ग्जरातस्य आरक्षिबलेन दिल्लीस्थे निजामुद्दीने तब्लीगी जमात इत्यस्य कार्यक्रमे भाग ग्रहीतार षोडश जना अभिज्ञाता

प्रधानमंत्री प्रधानमंत्रिण नरेन्द्रमोदिन आह्वाहने कोरोना संक्रमणं विरूध्य ऐक्यभावं प्रदर्शयितुं गतरात्रौ संपूर्ण देशे जनै दीपप्रज्ज्वालनं विहितम् राष्ट्रपति रामनाथ कोविंद उपराष्ट्रपति वेंकैयानायड् प्रधानमंत्री नरेन्द्रमोदीश्च दीपं प्रज्ज्वाल्य देशवासिभि सह ऐक्यं प्रदर्शितवन्त

गुजरात ग्जरातस्य आरक्षिबलेन दिल्लीस्थे निजामुद्दीने तब्लीगी जमात इत्यस्य कार्यक्रमे भाग ग्रहीतार षोडश जना अभिज्ञाता राज्यस्य आरक्षि महानिदेशक शिवानंद झा गतदिने आवोचत् यत् निगडनानन्तरं समेऽति चिकित्सकीय निरीक्षणाय प्रेषिता इदानीं यावत् आरक्षिबलेन षड्विंशति जना निगडीकृता अपि च ग्जरात आरक्षिबलेन पञ्चशताधिक सेना निवृत्ता आरक्षि अधिकारिण निषेधाज्ञा समये सेवायै प्न प्रचिता